भारत पाक भारतेन पाकिस्तानस्थे नानकाना साहिब गुरूद्वारे सद्योद्रापादितं हिंसाचरणे भूरिशो भर्त्संतम् तत्र सिखसमुदायस्य सुरक्षा कुशलता च सुनिश्चेतु शीघ्र पदक्षेपाय नवदिल्ल्यां पाकिस्तान प्रशासन् समाकारितम् विदेशमन्त्रालयेन एकस्यां विज्ञप्तौ द्य प्रोक्तं च हिंसाचरणे सम्मिलितान् विरूध्य पाक कठोरान् पदक्षेपान् गृह्कीयात् प्रधानमन्त्री वैज्ञानिका प्रधानमन्त्री श्रीनरेन्द्रमोदी वैज्ञानिकान् समाह्वयत् यत्ते राष्ट्रस्य द्र्ततर विकासार्थं न्तनाविष्कार एकस्वाधिकार प्रभूतोत्पादनं समृद्धि सम्पादनं चेति चतुर पदक्षेपान् गृहणीयू स गतदिवसे बेंगलूरु नगरस्थे कृषि विज्ञान विश्व विद्यालये भारतीय विज्ञानं संगोष्ठया सप्ताधिक शततमं संस्करणं समुद्धायति स्म लेह अतिशय शैत्य प्रभाविते लद्दाखस्थे लेह पर्वतीयक्षेत्रे दैनिकोपयोगिवस्त्रनाम् उपलब्धता सम्प्रति पूर्वपिक्षया सरला भविष्यति इत प्राक् प्रशासनेतर विमानै वस्तूनाम् आपूर्ति भवति स्म सम्प्रति लेह पर्वतीय परिषदा सैन्य बलै सह सन्धिं विधाय निर्णयोऽयं गृहीतोऽस्ति जम्मुकश्मीर परामर्शद केन्द्र शासिते जम्मू कश्मीर प्रदेशे उपराज्य पालस्य परामर्शप्रदेन केके शर्मणा कथितं यत् प्रदेशे जनानां परिदेवना यथाशीघ्रं यथा दूरीकृता स्यु तथा प्रशासनेन सततं प्रयत्यते

दलस्य राष्ट्रिय कार्यकार्यध्यक्ष जेपी नड़डा जनसभा समबोधयत् तेन स्पष्टीकृतं यदेष संशोधितो नागरिकता अधिनियम न खल् कस्यचिद् भारतीयस्य नागरिकताऽधिकारं हिनस्ति अपितु अधिनियमोऽयं तादृशानां जनानां मानवताधारेण साहाय्यं विधत्ते ये प्रतिवेशि देशेष् चिरातु उत्पीडनानि संमुखीकुर्वाणा सन्ति

प्रवञ्चनायामस्याम् एयर इण्डिया इति विमान सेवा समवायस्य परस्कोटि रूप्यकाणां हानिर्जातेति सूच्यते